निर्भया सामूहिक दृष्कर्म हत्या प्रकरणे गतदिवसे दिल्ली उच्च न्यायालयेन अपराधि चतुष्टयं विरुध्य मृत्युदण्डादेश प्रसारित जवाहरलालनेहरु विश्वविद्यालयस्य कुलपति एम् जगदीश कुमार परिसरे सद्यो द्रापन्नाया हिंसा घटनाया क्रमे परागतांश्छात्रान् प्रत्यागन्तुम् अध्यर्थितवान् विंशति प्रतिविंशति क्षेप चक्राणाम् अन्ताराष्ट्रिय क्रिकेट स्पर्धा मालिकायां गतरात्रौ इन्दौर समायोजिते द्वितीये द्वन्द्वे भारतेन श्रीलंका सप्तभि क्रीडकै पराजिता अमितशाह भ्रष्टाचार भाजपाध्यक्षो गृहमन्त्री अमित शाहो न्यगादीत् यत् केन्द्रे नरेन्द्र मोदि सन्नीत प्रशासनेन विगतेष् षट्स् वर्षेष् पारदृश्य भ्रष्टाचरण मुक्त च शासनम् उपलम्भितम् स अवदत् यन्मोदि प्रशासनस्य नीतिरियं साम्प्रतमपि न मनाक् परिवर्तिताऽस्ति श्रीशाहो गतदिवसे नवदिल्ल्यां श्रीनरेन्द्र मोदिन अद्यावधि प्रधानमन्त्रि जीवनम् अधिकृत्य सद्यो विलिखितस्य कर्मयोद्धा ग्रन्थ इति नाम्नो ग्रन्थस्य लोकार्पणाऽनन्तरं स्वीयोद्गारं प्रकटयति स्म दिल्लीउच्चन्यायालय निर्भया द्वादशोत्तर द्विसहस्रतम वर्षीये निर्भया सामूहिक दुष्कर्म हत्या प्रकरणे गतदिवसे दिल्ली उच्च न्यायालयेन अपराधि चतृष्टयं विरुध्य मृत्युदण्डादेश प्रसारित अतिरिक्त सत्र न्यायाधीशेन सतीश क्मार अरोड़ा वर्येण प्रोद्वोषितं यदिमे चत्वारो दोषिण मासस्यास्य द्वादशे दिनांके दिल्ली स्थे तिहाड़ कारागृहे प्रात सप्तवादने मृत्युपाशमारोयणीया जेएनयू विरोध जवाहरलालनेहरु विश्वविद्यालयस्य कुलपति एम् जगदीश कुमार परिसरे सद्यो द्रापन्नाया हिंसा घटनाया क्रमे परागतांश्छात्रान् प्रत्यागन्तुम् अध्यर्थितवान् गत रविवासरीय घटनां द्भाग्यपूर्णां वर्णयता तेनाश्वासितं यत् साम्प्रतं परिसर सर्वथा सुरक्षितोऽस्ति स गतदिवसे दिल्ल्यां वार्ताहरै सम्भाषते स्म

केन्द्रीय खाद्योपभोक्त्र विषय मन्त्री रामविलास पासवान प्रावोचत् यदिदानीम् अभियाचितादपि अधिक मात्रायां पलाण्डु प्रशासनेन आयातितोऽस्ति

केन्द्रीय राजस्व सचिवस्य डॉअजय भूषण पाण्डेयस्य आध्यक्ष्ये सम्पन्ने सम्मेलनेऽस्मिन् समवेतै केन्द्रीयै प्रादेशिकैश्व कर विभागायुक्तै करचौर्यावरोध समधिकतर राजस्व संग्रहादि विषया सविशेष विमृष्टा

केन्द्रीय कार्मिक प्रशिक्षण विभागेन ह्य प्रसारिताम् आधिकारिक विज्ञप्रौ स्पष्टीकृतं यन्नीतौ सम्प्रति जम्मू कश्मीर प्रदेश संवर्ग समापित क्रिकेट् विंशति प्रतिविंशति क्षेप चक्राणाम् अन्ताराष्ट्रिय क्रिकेट स्पर्धा मालिकायां गतरात्रौ इन्दौरे समायोजिते द्रितीये द्वन्द्रे भारतेन श्रीलंका सप्तभि क्रीडकै पराजिता